केन्द्रेण राजस्थानस्य कोटानगरस्थं जेकेलोन चिकित्सालयं विशेषज्ञ चिकित्सकानां दलमेकं सम्प्रेषितमस्ति केन्द्रीयान्वेषण विभागेन हिमाचलप्रदेशस्य एको प्रशासनिकाधिकारी अन्यं जनद्वयं च निगडितमस्ति नवदिल्या प्रगतिमैदाने अद्य प्रभृति समुद्घटितं विश्व पुस्तकमेलकम्

गतदिने बगदादे द्रापादिते अमेरिकीय ड्रोनाक्रमणे ईरान सेनाध्यक्षस्य कासिम सुलेमानी इत्यस्य मृत्योअनन्तरं खातिक्षेत्रे भूयोऽपि स्थिति गभीरा जातास्ति सन्दर्भेंडस्मिन् विदेशमन्त्रालयो ब्रूतेयत् देशद्वयमन्तरा विवर्धमानां आतति स्थितिमवलम्ब्य आविश्वं चिन्ताकृलं दरीदृश्यते कथमपि स्थितिरेषा अत्रैवावरोद्धं जगत् प्रयतते मन्त्रालयेनोक्तं यत् अशेषदेशे शान्ति स्थिरता स्रक्षा सन्धारणं च अस्मदीय प्रम्खमुदेश्यं विद्यते तत्रैव आक्रमणानन्तरं अमेरिकाया राष्ट्रिय सुरक्षा सम्मर्शद रॉबर्ट ओ ब्रेन इत्यसौ प्रावोचद यत् देशयोर्मघ्ये रक्तपातं देशस्य सुरक्षां च निध्याय अमेरिकाध्यक्षेण डोनॅल्ड ट्रम्पेण कासिम सुलेमानी इत्यस्य हत्याया निर्णय विहित अमेरिकीय सुरक्षा सम्मर्शद वाशिंग्टने प्रसंगेऽस्मिन् वार्ताहरान् संसूचयति स्म् अमेरिका तत्रैव ईरानी सेनाध्यक्षस्य मृत्योरन्तरं मध्यपूर्वीयक्षेत्रे जाजायमानां गभीराम् स्थिति नियन्त्रित्ं अमेरिका त्रि सहम्राणि अन्यानि अपि सैन्यबलानि तत्र प्रेषयति विगते सप्ताहे बगदादस्थे अमेरिकीय दूतावासे ईरानाक्रमणकारिभि ध्वंसाचरणं विहितमासीत् तदननतं अमेरिकादेशेन तत्र क्वैते सप्तशतं सैनिका प्रागेव सम्प्रेषिता आसन् अत्रांतरे देशयोर्मध्ये संजातां सर्वामिमां चिन्ताकृलां स्थितिमाधृत्य जनाना संरक्षणञ्चावधार्थ अमेरिकादेशेन ईराने निवसत अमेरिकीय नागरिका सत्वरं तद्देशात् निष्क्रमणार्थं सञ्चेतिता सन्ति प्रशासनम् केन्द्रेण राजस्थानस्य कोटानगरस्थं जेके लोन चिकित्सालयं विशेषज्ञ चिकित्सकानां दलमेकं सम्प्रेषितमस्ति एतदृद्देश्यं तथोक्त चिकित्सालये शताधिकानां शिशूनां मृत्युकारणान्वीक्षणं प्रभावितानां शिशूनां सम्चित चिकित्सा च विद्यते सीबीआई केन्द्रीयान्वेषण विभागेन हिमाचलप्रदेशस्य एको प्रशासनिकाधिकारी अन्यं जनद्रयं च निगडितमस्ति

नवदिवसात्मकं विश्वपुस्तक मेलकमिदं जनवरी द्वादशदिनांक यावत प्रतिदिनं एकादशवादनत आरभ्य अष्टवादनं यावत समुदघटितं भविष्यति

अम्नोक्तं यत् जनानां भूशं हि मैत्रीभूतं साहित्यं भवति अत्र मेलके भूयोऽपि षट्शतं पुस्तक प्रकाशका भागमावक्ष्यन्ति भारतं हि विश्वगुरू अवर्तत भारतेन जगत् सर्वाधिकं ज्ञानं लब्धमस्ति मेलकस्य विषयवस्त् गान्धी लेखकानामपि लेखक इति विद्यते

अधिकारिकरूपेण विगत वर्षादेव एतस्य ब्रेलदिवसायोजनस्य समारब्ध जात लुईस ब्रेल इत्येतस्य जन्मोत्सव प्रसंगे प्रत्येकस्मिन् वर्षे जनवरी चतुर्थे दिनांके दिवसोऽयं परिपाल्यते एतदद्देश्यं दृश्विहीनानां प्रति जनजागरणस्य महत्वं विद्यते